पश्चिमबंगाल असम तमिलनाड़ केरल प्रड़चेयां नैर्वाचनिक प्रचाराः सम्प्रति पराकाष्ठा प्राप्न्वन्ति

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्प स्वीकर्वन्त मख आवरक सन्धारयन्त सामाजिक द्रतां पालयन्त् पाणि पादं च यथा समयं प्रक्षालयन्तु

अयं दिवस स्वच्छ जलस्य महत्ता प्रदर्शयति अस्य दिवसस्य उद्देश्य जनेष् वैश्विक जल संकटस्य कृते जागरुकता प्रसारणं वर्तते

प्रधानमन्त्रिणः उपस्थितौ जल शक्ति मन्त्रिणः मध्यप्रदेश उत्तरप्रदेश मुख्यमन्त्रिणोः च मध्ये केन बेतवा संपर्क परियोजनायाः क्रियान्वयन सम्बद्ध विषये चर्चा भविष्यति अथ च सन्धि प्रपत्रे अपि हस्ताक्षरं करिष्यन्ति अनया परियोजनया बंदेलखण्डस्य जलाभाव क्षेत्रेभ्यः लाभः भविष्यति विशेषतः पन्ना टीकमगढ छतरप्र सागर दमोह दतिया विदिशा शिवप्री रायसेन बांदा महोबा झांसी ललितपुरेभ्यः जनपदेभ्यः परियोजनया लाभ भविष्यति

ह्याः प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिमबंगालस्य बांकुरायां एका जनसभा सम्बोधिता स्वीय सम्बोधने तेनोक्त यत् भाजपा दलस्य कौशलं प्रति विश्वासः अस्ति किन्तु तृणमूल कांग्रेस दलस्य विश्वासः सदैव भ्रमोत्पादनं प्रति अस्ति सममेव उक्तं यत् वर्तमानप्रशासनेन जना कदापि न संतुष्टा एवञ्च केन्द्रप्रशासनस्य नीतय अपि अत्र न सुलभायिता

जलीय समस्यासहितानां नैकासों समस्यानां समाधानम् अस्मदीय प्रशासनेन प्राथमिकतया निराकरिष्यते

ह्यः भारतेन द्वे स्वर्ण पदके एकं रजत पदकं च समर्जितम् दशमीटर परिमितायां भशण्डिका लक्ष्यवेध प्रतिस्पर्धायां भारतस्य पुरूष महिला दलाभ्याम इमे पदके समधिगते